श्रीमोदिनाराष्ट्रिय ोषणाभियानस्य महत्त्वम विशदीकृतम् प्रधानमन्त्री नरेन्द्रमोदी अद्य जी सप्त राष्ट्राणां शिखरसम्मेलने सहभागाय बहरीनदेशात् फ्रांसराष्ट्रं प्रति प्रस्थित

राजकीयसम्मानेन तस्य अत्येष्टि सञ्जाता जम्मूकश्मीरस्य आरक्षिमहानिदेशक दिलबागसिंह प्रत्य ादयत् यत् राज्ये आतङकिन विरुध्य कार्याचरणं यथावत् प्रवर्तयिष्यति राज्ये औषधानां नैयून्यम् अथ च अधिक मूल्येष् विक्रयसम्बद्धो मिथ्या प्रचार प्रशासनेन अ ाकृत

अम्ना नगर निगमेभ्य जन दप्रशासनेभ्य ग्राम ञ्चायतेभ्यश्च आकरदवस्तूनां न प्रयोगव्यवस्थो ाया इंधनरुप्रेण प्रयोगव्यवस्था च अध्यर्थिता श्रीमोदिना पृथिव्यां त्रीणि रत्नानि जलमन्न सुभाषितम मूढै पाषाणखण्डेष् रत्नसंज्ञाविधीयते इति श्लोक माध्यमेन राष्ट्रिय ोषणाभियानस्य महत्वं वर्णितम् मैन वर्षेस वाइल्ड इति कार्यक्रमद्वारा वन्यजीवसंरक्षणे प्रकृतिसंरक्षणे च समेषाम् उत्तरदायित्वमप्रि प्रधानमन्त्रिणा विशदीक़तम्

शिखरसम्मेलनावसरे प्रधानमन्त्री नरेन्द्रमोदी द्वि क्षीय सम्भाषणमप्रि विधास्यति जेटली अत्येष्टि वरिष्ठभाज ानेत् प्राक्तन् विदेशमन्त्रिण अरुणजेटलिन अत्येष्टि अदय दिल्लीस्थे निगमबोधघट्टे राजकीयसम्मानेन सञ्जाता तस्मै अन्तिम श्रद्धाञ्जलिं प्रदात्ं दलस्य नेतार कार्यकर्ताश्च उ स्थिता अवर्तन्त

अयं सङ्घर्ष नारायण र जन दस्य अब्झमादक्षेत्रे गतदिने अप्रारब्ध

सद्यैव श्रीलड़कात तमिलनाड़राज्ये षडातड़किनां प्रवेश सङ्केतित आसीत् एतौ कोच्चि विमान तनात् आतङ्किभ्य साहाप्यप्रदान विषये सान्दिग्धौ स्तः जम्मकश्मीरसरक्षा जम्मूकश्मीरस्य आरक्षिमहानिदेशक दिलबागसिंह प्रत्य ादयत् यत् राज्ये आतङकिन विरुध्य कार्याचरणं यथावत् प्रवर्तयिष्यति राज्यस्य सर्वेष् जन देष् स्रक्षा व्यवस्था सुदृढ़ा करिष्यते सीमस्रक्षाबलस्य महानिदेशकेन रजनीकान्तमिश्रेण सह संय्क्त स्रक्षो वेशने अम्ना प्रसन्नता प्रकटिता यत् आरक्षिणां स्रक्षाबलानां च प्रयासै सम्चित रिणामा प्राप्यन्ते जम्मुकश्मीरे औषधम् जम्मूकश्मीरप्रशासनेन राज्ये औषधानां नैयून्यम् अथ च अधिक मूल्येष् विक्रयसम्बद्धो मिथ्या प्रचार अ ाकृत प्रशासनेन प्रोकृत् यत् कश्मीरो त्यकायां सार्धकादश सहस्र औषधकेन्द्राणि वर्तन्ते

अस्माकं वार्ताहरेण सूचितं यत् आधिकारिकस्रोतसाम् अन्सारेण आगामि सप्ताहत्रयाय सर्वविध बालखाद्य दार्थानि र्याप्तमात्रायां विद्यन्ते

दीक्षान्तसमारोहस्य अध्यक्षेण मानवसंसाधनविकासमन्त्रिणा डॉ रमेश ोखरियालनिशङकेन छात्रेभ्य उ ाधयो ायनीकृता